ठाकरेवर्य शिवसेना एन्सीपी कांग्रेस्दलानां च संय्ति प्रशासनस्य अध्यक्ष भविष्यति राज्य विधान सभायां सम्प्रति शिवसेनाया षाप्पिञ्चाशत् विधायका एन्सीपी दलस्य चतुः पञ्चाशत् अथ च चतुश्चत्वारिशत् कांग्रस्दलीया विधायका सन्ति राज्यपालेन कोश्यारीवर्येण सदने बहमतं प्रमाणयित्ं ठाकरेवर्याय दिसम्बरमासस्य तृतीयं दिनाकं यावत् कालोस्ति प्रदत्त

केन्द्रीय गृहमन्त्री अमितशाह सम्मेलनस्य समापन समारोहस्य मुख्यातिथि भविष्यति

प्रस्तावित संशोधनान्सारं विशिष्ट स्रक्षा समूह द्वारा प्रधानमन्त्रिणं तस्य निक परिजनेभ्यश्च ये हि शासकीयावासे तेन सह निवसन्ति तेभ्य सुरक्षा उपपादयिष्यते विशिष्य सुरक्षा समूहेन प्राक्तन प्रधानमन्त्रिभ्य अथ च तेषां निक पिरिजनेभ्य ये हि शासकीयावासे निवसन्ति तेभ्य पञ्चवर्षाणि यावत् सुरक्षा प्रदास्यते

अनेन उभयो केन्द्रशासित प्रदेशयो कृते भद्रतर नागरिक सौविध्यम् उपपादयिष्यते अथ च प्राशासनिकव्यये अपि न्यूनता भविष्यति

देशस्य आर्थिकस्थितिमधिकृत्य राज्यसभायां अल्पकालिके चर्चावधौ वित्तमन्त्री प्रत्युत्तरति स्म अमुनोक्तं यत् भारतीयां अर्थव्यवस्थां अतोऽपि सुदृढीकर्त् प्रशासनं यथावश्यकान् पदक्षेपान् समाचरति सममेव वित्तमन्त्रिणा संसूचितम् प्रधानमन्त्रिणा आर्थिकस्थितौ स्वयं दृष्टि सन्धार्यते इत पूर्व विपक्षिदलेन प्रशासनं समाक्षिप्तमासीत् यत् भारतीयार्थव्यवस्था महत्मान्द्यस्थितिं गतास्ति

ब्ल ब्ल चक्रवात केन्द्रीय गृहराज्यमन्त्रिणा नित्यानन्दरायेन बुलबुल चक्रवात सम्बद्ध प्रश्नविषये राज्यसभायां लिखितोत्तर माध्यमेन सृचितं यत् प्रवर्तमान वित्त वर्षे केन्द्रप्रशासनेन बंगालराज्याय चतुर्दशोत्तर चतुश्शत दशमलव नवति कोर्डिकप्यकाणि अथ च ओडिशा राज्याय द्वापञ्चाशदधिक पञ्चशत रूप्यकाणि राज्यापत्प्रतीकारनिधे अन्तर्गत पूर्वमेव आवणित्रिानि सन्ति